कोविड सन्देश प्रिया श्रोतारः कोविड ऊनविंशति इत्यस्याः संक्रमणे वृद्धिः प्नः जायते एतदर्थं निवेद्यते यतः असावधानतां मा व्यवहरन्त्

भारतेन इयम उपलब्धिः चत्र्दशोतरशतदिवसेष् अधिगता तट्रैव चीनदेशेन नवदशोत्तरशतदिवसेष् अमेरिकादेशेन पञ्चदशोतरशतदिवसेष् इदं लक्ष्यम े अधिगतम े देशे अध्ना पर्यन्तं सप्तदशकोटिसूच्यौषधानि प्रदत्तानि सन्ति

अस्य वयोवर्गस्य कृते अस्य मासस्य प्रथमदिनात प्रहत्तमस्य सूच्यौषधीकरणाभियानस्य प्रारम्भः विहितः अस्ति केन्द्रप्रशासनेन महामार्याः जनान ी रक्षित्ं नैके पदक्रमाः उत्थापिताः सन्ति केन्द्रप्रशासनम इदं स्निश्चिनोति यत अन्यदेशेभ्यः प्राप्तचिकित्सासाहाय्यसामग्री राज्यानि केन्द्रशासितप्रदेशान ा च प्रति शीघ्रतया प्राप्येत अध्नावधि सार्धषट्सहस्रतोधिकानि आक्सीजनसंयन्त्राणि प्रायशः चत्स्सहस्रम आक्सीजनभण्डारकाणि षोडश आक्सीजन उत्पादकसंयन्त्राणि सार्धचत्स्सहस्रतोधिकानि जीवितसाहाय्योकरणानि रेमेडिविसरसूच्यौषधानि च राज्येभ्यः केन्द्रशासितप्रदेशेभ्यः च सम्प्रेषितानि सन्ति सूचना प्रसारण मंत्री प्रकाश जावडेकरः सूचना प्रसारण मंत्री प्रकाश जावडेकरः उक्तवान यत केन्द्रप्रशासनं देशे कोविडाकरणानां वृद्धिं सुक्ष्मदृष्ट्या पश्यति तथा च तत्परतया पदक्रमान ा उत्थापयति महामार्याः द्वितीयतरङ्गस्य प्रतिसङ्घर्ष सज्जतास् न्यूनतायाः आरोपाणां खण्डनं क्र्वन केन्द्रीय मंत्री प्रोक्तवान यत जनवरीमासे कोरोनारोगिणां संख्यायां न्यूनतां दृष्ट्वा अपि प्रशासनेन अस्मिन सन्दर्भे सूक्ष्मदृष्टिः रक्षिता सः सबलं प्रत्यपादयत यत स्वास्थ्य मंत्रालयः जनवरीमासे केरले वर्धमानानि प्रकरणानि दृष्ट्वा राज्यस्य सहायतायै केन्द्रीय दलानि प्रैषयद् आसीत ा प्रसिद्धे आङ्ग्लसमाचारपत्रे प्रकाशितं लेखम अभिलक्ष्य श्रीमान जावडेकरः उक्तवान यत केन्द्रसर्वकारः कोविडं विरूध्य सङ्घर्षे अग्रणी भूमिकाम आवहति तथा च राज्यानां पूर्णसाहाय्यं करोति श्रीमान जावडेकरः उक्तवान यत यदयपि कोविड प्रबंधनं राज्यानां विषयः अस्ति तथापि केन्द्रप्रशासनं कोविडनिदानाय यथासमयं परामर्शान दिशानिर्देशान च यच्छति केन्द्रेण कोविडनियन्त्रणाय राज्यानां प्रबन्धान वीक्षित्ं प्रत्येकं राज्ये दलानि नित्युक्तानि सन्ति केन्द्रेण अध्नावधि विशेषज्ञानां पञ्चसप्ततिदलानि सम्प्रेषितानि सन्ति

राज्यानां केन्द्रशासित प्रदेशानां पार्श्वे अध्ना अपि एककोटिस्च्यौषधानि सम्पलब्धानि सन्ति राज्यानि उपय्क्तसूच्यौषधानां सङ्ख्यां तु प्रदर्शयन्ति परन्तु नष्टसूच्यौषधानां न दर्शयन्ति सममेव सशस्त्रसेनाभ्यः प्रदत्तानि सूच्यौषधानि अपि सम्मिलितानि न सन्ति

एष् भाजपा दलस्य दश असम गण परिषद इति दलस्य दवौ यूपीपीएल इति दलस्य च एकः मन्त्री सम्मिलिताः सन्ति श्रीमान सरमा जाल्कबाडी विधानसभा निर्वाचन क्षेत्रस्य प्रतिनिधित्वं करोति सह पञ्चादश सहस्रोतर द्विसहस्राब्दे भाजपा इति दले सम्मिलितः अभवत इतः प्राक तेन असम राज्ये तरुण गोगोई इत्यस्य नयाकत्वे काँग्रेस दलीय सर्वकारे नैकानां महत्त्वपूर्ण विभागानां कर्यभारः ऊढः आसीत म्ख्यमन्त्रिणः पदस्य शपथग्रहणस्य अनन्तरं हिमंत बिस्वा सरमा निवेदितवान ायत ाउग्रवादीदलैः हिंसा त्यक्तव्या वार्ताहरैः सह संभाषणे श्रीमान ा सरमा उल्फा नेतारं परेश बरुआ इत्यम्मं प्रति अपि निवेदितवान यत सः म्ख्यधारायां सम्मिलितः भवत् नवनिर्वाचितः म्ख्यमंत्री प्रोक्तवान यत नवनिर्वाचित सर्वकारस्य प्रथमं मंत्रिमंडलीयम उपवेशनं श्वः भविष्यति